राष्ट्रपति रामनाथ कोविन्द फिलिपीन्स् जापान देशयो सप्ताहावधिक यात्रा प्रसंगे अद्य प्रतिष्ठते

मलयेशियायाम् अनुवर्तमानास् जौहर सुल्तान चषकीय हॉकी क्रीडा प्रतिस्पर्धास् द्यः समायोजिते प्राग्पान्त्य द्वन्द्वे भारतेन ऑस्ट्रेलिया दलम् एकं विरुध्य पञ्चभिर्गोलकै पराजितम् विधानसभा निर्वाचनानि महाराष्ट्रे हरियाणायां च भावि निर्वाचनेभ्यो दिवस त्रय मात्रम् अवशिष्टमालक्ष्य तत्र विभिन्नानां राजनैतिक वृन्दानां प्रचाराभियानानि सम्प्रति परां काष्ठां स्प्रशन्ति प्रधानमन्त्री श्रीनरेन्द्र मोदी गतदिवसे महाराष्ट्रस्य नवी मुम्बय्याम् अकोला जालना पानवेल क्षेत्रेष् जनसभा त्रयं सम्बोधितवान् संबोधने श्रीमोदी न्यगादीत् यद् दिल्ल्यां नरेन्द्र मुबव्यां च देवेन्द्र नव भारतस्य निर्माण स्वप्नं साकारयित्ं सन्नद्वौ स्त अपरतो हारियाणायां तिगाँव क्षेत्रे जनान् सम्बोधयता भाजपाध्यक्षेण गृहमन्त्रिणा अमित शाहेन कांग्रेसदलं मतप्राप्तये राष्ट्रवाद विरोधार्थं कट्वालोचितम् प्नर्निर्वाचनम् राज्यद्रये विधानसभा निर्वाचनै साधंमेव बिहारे समस्तीपुर लोकसभासनाय महाराष्ट्रे सतारा लोकसभासनाय च पुनर्निर्वाचनान्यपि मासेऽस्मिन् एकविंशे दिनांके समायोजयिष्यन्ते किञ्च सप्तदश राज्यानाम् एक पञ्चाशद् विधानसभा क्षेत्रेष् पुनर्निर्वाचनान्यपि तस्मिन्नेव दिनांके निष्पादयिष्यन्ते

एकया दृश्य श्रव्य प्रचार वाहिन्या समं साक्षात्कारावधौ श्रीशाहो न्यगादीत् यत् राष्ट्रियस्तरे उभे अपि दले प्रधानमन्त्रिणो नरेन्द्र मोदिनो नेतृत्वे राज्यस्तरे च वर्तमान मुख्यमन्त्रिणो नीतीश कुमारस्य नेतृत्वे सम्भ्य कार्यमाचरत राष्ट्रपपति यात्रा राष्ट्रपति रामनाथ कोविन्द फिलिपीन्स जापान देशयो सप्ताहावधिक यात्रा प्रसंगे अद्य प्रतिष्ठते विदेश मन्त्रालयीय प्रवक्त्रा रवीश कुमारेण उदीरितं यत् श्री कोविन्द जापान भूपते नारुहितो महाभागस्य राज्याभिषेकोत्सवे भागं ग्रहीतुं तत्र गच्छति जम्मूकश्मीर लद्दाख जम्मूकश्मीर शासनेन अभिनव केन्द्रशासित प्रदेशं लद्दाखं निभालयित् लद्दाख विषयक विभाग शासकीय सचिव रिग्जियान् सैम्फिल च लेहं प्रति प्रेषितौ लद्दाख क्षेत्रम् धिकारिक दृशा मासस्यास्य एकत्रिशदिनाङ्के ऊनविंशत्यधिक द्विसहम्र तम्या जम्मुकश्मीर पुनसंघटन धाराया अनुसारि नृतन केन्द्रशासित प्रदेशत्वेन उद्घोषयिष्यते

हॉकी मलयेशियायाम् अनुवर्तमानासु जौहर सुल्तान चषकीय हॉकी क्रीडा प्रतिस्पर्धासु ह्य समायोजिते प्रागुपान्त्य द्वन्द्वे भारतेन ऑस्ट्रेलिया दलम् एकं विरुध्य पञ्चभिर्गोलकै पराजितम्